भारतेनोक्तं यदसौ अन्यराष्ट्र अह परस्परहित सम्बद्धविषयान् सर्वदा विचारयति

अत्रावसरे माईकपोम्पियो प्रावोचत् यत् भारतम् अमेरिकाया महत्त्वपूर्णसहयोगि राष्ट्रं वर्तते देशद्रयस्य परस्परं सहयोगं च समेधते पाम्पियो वर्यणे सह संवादे विदेशमन्त्री डॉ एस जयशङ्कर प्रावोचत् यत् भारतम् अन्यराष्ट्र मह परस्परहित सम्बद्धविषयान् सर्वदा विचारयति नेतृद्वयस्य मध्ये द्वप्रक्षिकविषयेषु चर्चा सञ्जाता

केन्द्रे राष्ट्रिय लोकतात्रिक संयुति दलस्य द्वितीयावतार क्रमे गृह मन्त्रालयस्य प्रभार ग्रहणाऽनन्तरं श्रीशाहस्य प्रथमा जम्मू कश्मीर यात्रा वर्तते असौ यात्रायां प्रथमतया तत्रत्य राज्यपालेन सत्यपाल मलिकेन साधं कश्मीरोपत्यकाया साम्प्रतिकीं सुरक्षा स्थितिम् अधिकृत्य चर्चामाचरिष्यति

मानवकेन्द्रितभाविसमाज सम्मेलनस्य मुख्यविषय वर्तते सम्मेलने खाद्य सुरक्षा ऊर्जस सुरक्षा आर्थिकस्थिरतादिविषय चर्चिष्यन्ते राज्यसभायां प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रावोचत् यत् दशकानन्तरं देशे पूर्णबहुमत संयुतं प्रशासनं विद्यते राज्यसभायां राष्ट्रपते अभिभाषणे धन्यवाद प्रस्तावस्योपरि राज्यसभायां प्रत्यत्तर प्रदानावसरे श्रीमोदिना प्रतिपादितं यत् देशस्य मतदातभि स्थिरता समर्थिता सम्बस्थिरता लोकतन्त्रस्य सुखदं चिह्नं वर्तते लोकसभा सैनिकविद्यालया रक्षामन्त्री राजनाथसिंह लोकसभायां प्रावोचत् यत् प्रशासनेन राजस्थाने उत्तस्प्रदेशे उत्तराखण्डे ओडिशायां तेलंगानायां च पञ्च नूतनसक्रिविद्यालयानां स्थापना प्रस्तावितास्ति लोकसभायां प्रश्नमेक समृत्तरता रक्षामन्त्रिणा निगदितं यत् राज्यप्रशासन विद्यालयानां स्थापनायातिशुल्कं भूमिं प्रदास्यति

सुरक्षा परिषद सदस्यता एकविंशत्युत्तर द्वि सहस्रतम वर्षाय अथ च द्वाविंशत्युत्तर द्वि सहस्रतम वर्षाय भविष्यति संयुक्तराष्ट्रे भारतस्य स्थायी प्रतिनिधि सप्त ि अकबरूद्दीन एकस्मिन् ट्वीट सन्देशे समर्थन प्रदातृभ्य राष्ट्रेभ्य आभारं प्रकाशयत्

त्रालक्षेत्रे अद्य प्रात अन्वेषणाभियान प्रारब्धमासीत् स्रोतोभि सूचितं यत् मृतातङ्किन अभियानं नद्य जातम् क्षेत्रेस्मिन अन्वेषणाभियानं च साम्प्रतमपि प्रचाल्यते

मन की बात प्रधानमन्त्री नरेन्द्रमोदी मन की बात कार्यक्रमे देशवासिनां समक्षं स्वीयविचारान् प्रस्तोष्यति